राष्ट्रपतिः निगदति यत् महात्मगान्धिनः शान्ति समानता ऽहिंसानां दृष्टिकोणः साम्प्रतं भूयोऽपि प्रासंगिकः वर्तते सर्वाण्यपि आतंकिसंघटनानि विरुद्ध सम्मिलित कार्याचरणार्थं भारतामेरिका देशाभ्यां समाकारितम् संयुक्त राष्ट्र सुरक्षा परिषदि स्थायि सदस्यतायै अमेरिका देशेन भारतं समर्थितम् पोस्को सम्बद्ध प्रकरणानां शीघ्र समाधानार्थं तेलंगाना राज्येन षट्रिंशत् त्वरित न्यायालयानां स्थापनार्थं आद्विष्टम्

साहेब गंज पाकर दमका जमतारा देवघर गोड्डा जनपदानाम् अथ च संथाल परगना क्षेत्रस्य षोडश विधानसभासनेष् मतदानम् अनुष्ठीयते बोरियो बरहैत लितीपारा महेशपुर सिकारीपारा विधानसभा सनेष् मतदानं प्रातः सप्तनादनादारभ्य अपराह्ने त्रिवादनपर्यन्तं प्रचलिष्यति एतानि क्षेत्राणि नक्सल दृष्प्रभावितानि सन्ति अवशिष्टेष् एकादश विधानसभासनेष् मतदानं पञ्चवादन यावत् प्रचलिष्यति शान्तिपूर्णरीत्या मतदानायोजनार्थं व्यापक सुरक्षाप्रबन्धाः विहिताः सन्ति राष्ट्रपति गान्धी राष्ट्रपतिना रामनाथकोविन्देन प्रोक्तं यत् महात्मागान्धिनः शान्ति समानताऽहिंसानां दृष्टिकोण विषये वैश्विकस्तरे आदरभावः वर्तते अथ च एते आदर्शाः साम्प्रतमपि प्रासंगिकाः वर्तन्तते गतदिने राष्ट्रपति भवने महात्मागान्धिनः साधैकशत्तम जयन्ती समायोजन समितेः द्वितीयोपवेशनस्य अध्यक्षतां विदधता राष्ट्रपतिना एतत् सम्दीरितम्

एतद्ववर्षीयं दादरा नागर हवेली दमनदीव केन्द्र शासित प्रदेशयोः एकीकरण सम्बद्ध विधेयकं संसदः सदनद्वयेन अभ्यूपगतम् केन्द्रीय गृहराज्य मन्त्रिणा जीकृष्ण रेड्डिना प्रोक्तं यत् भद्रतर प्रशासनाय केन्द्रशासित प्रदेशद्वयस्य एकीकरणं विहितमस्ति

देशद्रयेन पाकिस्तानम् अध्यर्थित यत् तस्य नियन्त्रणाधीनस्य कस्यचिदपि क्षेत्रस्य उपयोगः आतंकवादार्थ नैव भवेत् एतत् सुनिश्चेत् तेन त्वरितम् अपरिवर्तनीयं च कार्यचरणं वियेयम् भारतामेरिका देशयोर्मध्ये ट्र प्लस ट्र त्वारख्यं मन्त्रिस्तरीय सम्भाषणानन्तरं प्रसारिते संयुक्तवक्तव्ये निगदित यत् नवम्बर मासिके मुम्बय्यात कवाधाक्रमणं पठानकोटातंकवाद्याक्रमणं च समेत्य सर्वविध पारेसीमातक वाद्याक्रमणार्थं दोषिणः विरुध्य व्यवहत्त् पाकिस्तानम् अध्यर्थितम्